केन्द्र प्रशासनेन देशस्य विभिन्नेष् दिग्भागेष् सार्ध द्वादश सहस्राणि आयष स्वास्थ्य कल्याण केन्द्राणि प्रतिष्ठापयितुं लक्ष्यं निर्धारितम्

अपि च राष्ट्रपति श्रीरामनाथ कोविंद स्विट्जरलैण्ड देशीयान् उद्योग समवायान् समाद्वयत् यत्ते भारते निवेशानाम् अवसरान् ज्ञातुम् आन्तर्जालिकं भारतीय निवेश पटलं पश्येयु पलाण्डु गतसप्ताहात् विपणिस् पलाण्डो समेधमानं मूल्यं निध्याय प्रशासनेन तस्य निर्याताय न्यूनतम मूल्यम् प्रतिटन् सार्थाष्ट शत डॉलरात्मकं निर्धारितम् अस्योदेश्य पलाण्डो निर्याते शैथिल्यं विधाय गृह्धविपणिष् मूल्यापचिति वर्तते प्रशासनम् आयुषकेन्द्राणि केन्द्र प्रशासनेन देशस्य विभिन्नेष् दिग्भागेष् सार्ध द्वादश सहस्राणि आयुष स्वास्थ्य कल्याण केन्द्राणि प्रतिष्ठापयितुं लक्ष्यं निर्धारितमस्ति एषु चतुःसहस्राणि केन्द्राणि एतस्मिन् वर्षे प्रशासनेन प्रतिष्ठापनीयानि विद्यन्ते एतच्च तथ्यं गतदिवसे नवदिल्ल्यां सफदरजंग चिकित्सालये यूनानी चिकित्सा केन्द्रस्योद्वाटनावसरे आयुष विभागीयो मन्त्री श्रीपाद यशो नायकप्रकाशमानीतवान्

एषां विक्रयेण लब्धो द्रव्यराशिश्च गड़्गानद्या संरक्षणाय परिष्करणाय च सम्पयोक्ष्यते संस्कृति मन्त्री प्रह्नलाद पटेल असूचयत् यदेतानि उपहृत वस्त् जातानि सम्प्रति नवदिल्ल्यां राष्ट्रिय आध्निककला वीध्यां प्रदर्शनाय स्थापितानि सन्ति राष्ट्रपतिस्विट्जरलैण्डम् राष्ट्रपति श्रीरामनाथ कोविंद स्विट्जरलैण्ड देशीयान् उद्योग समवायान् समाद्वयत् यत्ते भारते निवेशानाम् अवसरान् ज्ञातुम् आन्तर्जालिकं भारतीय निवेश पटलं पश्येयुः स गतदिवसे तत्रत्येबर्न नगरे भारत स्विट्जरलैण्डयो वाणिज्यसंघेन समायोजितं देशद्रयस्य वाणिज्य गोलासन्द सम्मेलनं समुद्रोधयति स्म

प्राक्तन लेखानियन्त्रक महालेखा परीक्षकस्य विनोदरायस्य रि थिंकिंग गुड गवर्नेंस इति पुस्तकस्य लोकापर्ण कार्यक्रमे श्रीनायड् उच्चतमन्यायालस्य विस्ताराय देशस्य अन्यभागेषु शीर्षन्यायालयस्य शाखानं स्थापनाय च समाद्वानं विहितवान्